एतदभिलक्ष्य जनेष् महान् उत्साह दृष्ट

सुप्रसिद्ध चलचित्र अभिनेता रजनीकान्त नवदशाधिक द्वि सहस्रतमीयेन सुप्रतिष्ठितेन दादा साहेब फाल्के पुरस्कारेण सम्मानयिष्यते प्रधानमन्त्री नरेन्द्र मोदी फाल्के प्रस्कार प्राप्त्यर्थम् अभिनेतार रजनीकान्त वर्धापयन् उक्तवान् यत् अस्य लोकप्रियता दर्शकाना नैकवंशेष् अस्ति स तदीय विविध भूमिकाभ्य असाधारण व्यक्तित्वाय प्रसिद्ध अस्ति अमेरिकादेशेन वैदेशिक कर्मकराणां कृते एचवनबी इत्याख्याया वीजा इतिअधिकारपत्रस्य अवधि प्रवर्धित येन असंख्याका भारतीया ये संगणकीय क्षेत्रे कार्यरता सन्ति चिन्तामुक्ता अभवन्

केन्द्रीय स्वास्थ्य मन्त्रालयेन उक्तं यत् विगते चतुर्विंशति होरावधौ त्रि षष्टि सहस्रोत्तर विंशति लक्षाधिका जना सुच्यौषधिं प्राप्तवन्त अत्र अवधौ अशेष देशे त्रिंशत् सहस्रं नृतनानि कोविड़ संक्रमण प्रकरणानि समक्षम आगतानि सम्प्रति संक्रमितानां संख्या आहत्य द्वा विशति लक्षाधिक एक कोटित अपि अधिका जाता गतदिने कोविड़ ऊनविशति संक्रमणात् ऊन षष्ट्यधिक चत्ःशतं जना मृता इत्थं मृतकानां संख्या वर्धित्वा सम्प्रति सप्तविंशत्यधिक नवशतोत्तर द्विषष्टि सहम्राधिक एकलक्षमिता जाता अत्रान्तरे विगते चतुर्विंशतिहोरावधौ चतुस्सहस्रं जना कोरोणासंक्रमणात् विमुक्ता देशे इदानीं यावत् कोरोणा रोगात् विमुक्तानां प्रतिशतता त्रिनवति दशमलव अष्ट नवमिता जाता मन्त्रालयेन उक्त यत् अध्नावधि चतुर्दश लक्षाधिक एककोटि संख्याका रोगिण स्वस्थीभूता अद्य प्रभूति पञ्च चत्वारिशत् वर्षाधिकेभ्य वयोवर्शीयेभ्य जनेभ्य कोविड् संक्रमण रोधि सूच्यौषध प्रदानाभियानम् आरब्धम् एतदभिलक्ष्य जनेष् महान् उत्साह दृष्ट निर्वाचनम् असम पब असमपश्चिमबंगालयो विधानसभानिर्वाचनस्य द्वितीयचरणस्य मतदानं शान्तिपूर्णरीत्या अभवत् प्रात कालादेव मतदानकेन्द्राणां बहि सुदीर्या पंक्तय आसन् स्वतन्त्रतया निष्पक्षमतदानाय च सर्वविध सन्नद्वता सुरक्षाप्रबन्धादयश्च निर्वाचनायोगेन विहिताआसन् मतदानप्रक्रियायां पारदर्शिता सुस्थापनायै वीवी पैटइत्याख्यया वैद्युत उपकरणेन चिटिका अपि संदर्श्यमाना आसीत् असमराज्ये षड्वादनपर्यन्तं पश्चिमबंगाले च सार्धषड्वादन यावत् मतदानम् अभवत् असमराज्ये अद्य पञ्चत्वारिशदधिक त्रिशताना प्रत्याशिना भाग्यस्य निर्णय नैर्वाचनिक उपकरणेष् सुरक्षित जात येष् षड्विंशति महिलानां संख्या आसीत् अस्मिन् चरणे जागीरोडत पीयूषहजारिका धोलाईक्षद्विपरिमलश्क्लः रंगियात भाबेश कलितादिभि सह निवर्तमान विधानसभाया उपसभापति अमिनुल हक लस्करश्च सोनाई क्षेत्रत निर्वाचनभूमौ संघर्षरता सन्ति पश्चिमबंगालराज्ये च तृणमूल कांप्रेस दलाध्यक्षा ममताबैनर्जी श्भेन्द अधिकारी मीनाक्षीमुखर्जी हुमायुकबीर सोहोमचक्रवर्ती अपि च अशोकडिंडादय प्रमुखनेतार अद्यतनीय निर्वाचने संघर्षशीला सन्ति सर्वेऽपि प्रमुखदलानां नेतार तीव्रगत्या निर्वाचनसम्बद्धासुसभासु संबोधयन्त सन्ति भाजपादलनेत्रा नरेन्द्रमोदिना च स्वकीय सार्वजनिक संबोधने बंगालराज्ये भाजपादलस्य विजय सु्निश्चित इति घोषितम् प्रतिद्यीपरावर्तनम् केन्द्रीयप्रशासनेन अल्पकालीय धनसंरक्षण संबंधितानां योजनानाम्परि दीयमानस्य प्रतिदेयस्य परिवर्तनम् पुनरावर्तितम् वित्तमन्त्रिणा उक्त यत् लध् धन संरक्षणात्मकानां योजनानाम् उपरि प्रतिदेयमिति गतमार्चमासान्री एव स्थास्यति रिजर्वबैंकम् नृतनव्यवस्था भारतीय रिजर्व बैंकेन अन्येभ्य बैंकेभ्य वित्तीय संस्थाभ्य च आन्तर्जालिक आदान प्रदान प्रक्रियायै नूतनां व्यवस्थां प्रवर्तयित् निर्धारिता समयसीमा षण्मासावधये अप्रेसारिता सम्प्रति वित्तीय संस्था सेप्टेम्बर मासस्य व्रिंशत्दिनांक यावत् नूतन व्यवस्थां प्रवर्तयित् शक्न्वन्ति

इत पूर्व अस्या प्रक्रियाया अन्तिमा तिथि द्यस्तनपर्यन्तमेव आसीत्

सूचना प्रसारण मन्त्रिणा प्रकाश जावडेकरेण अद्य एतद्रिषये घोषणा कृता रजनीकान्ताय अयं पुरस्कार आगामि मासस्य तृतीये दिनांके प्रदास्यते ध्यानास्पदम् अस्ति यत् दादा साहेब फाल्के पुरस्कार भारतीय चलचित्र जगत सर्वाधिक प्रतिष्ठित पुरस्कार अस्ति प्रधानमन्त्री रजनीकान्त प्रधानमन्त्री नरेन्द्र मोदी फाल्के प्रस्कार प्राप्त्यर्थम् अभिनेतारं रजनीकान्तं वर्धापितवान् श्री मोदी एकस्मिन् ट्वीट् सन्देशे लिखितवान् यत् रजनीकान्त तादृश अभिनेताअस्तियस्य लोकप्रियता दर्शकानां नैककंशेष् वर्तते स तदीय विविध भूमिकाभ्य असाधारण व्यक्तित्वायच प्रसिद्ध अस्ति

उत्कलदिवसरूपेण परिपाल्यमानेऽस्मिन् दिवसे षड्र्रिशदधिकैकोन विंशतितमे ख़िष्टाब्दे अस्य राज्यस्य स्थापना अभवत् अवसरेऽस्मिन् राष्ट्रपति उपराष्ट्रपति प्रधानमन्त्री अन्ये च गणमान्यजना प्रदेश वास्तव्यान् वर्धपनानि वितरितवन्त राष्ट्रपति रामनाथकोविन्द उत्कलदिवसस्य श्भकामना प्रकटयन् स्वट्वीटा लेखे अलिखत् य् ओडिशाया भूमि समग्रां मानवजातिं शान्तिप्रेमयो शास्वतसन्देशं प्रददाति तेन राज्यस्य सातत्यपूर्णविकासाय श्भेच्छा प्रकटिता अम्बइक्रिरावकाश केन्द्रीय सर्वकारेण डॉ भीमरावअम्बेडकरस्य जयन्त्यावसरे अप्रैलमासस्य चतुर्दशतालिकायां सर्वकारीय कार्यालयानां पिधानस्य निर्णयो कृत कार्मिकमंत्रालय अस्य अवकाशस्य विषये सूचितवान्यत् केन्द्रीयसर्वकारस्य कार्यालयान् अतिरिच्य आराष्ट्रस्य सर्वेष् औद्योगिकसंस्थानेषु अपि अवकाशो भविष्यति

राजधान्या दिल्ल्याम् अत्र दश रूप्यकात्मिका अपचितिजाता सम्प्रति अस्य मूल्यं प्रति भाण्डंनवाधिक अष्टशतं जातम् अमर्खिा वीजा अमेरिका राष्ट्राध्यक्षेण जो बाइडेनेन वैदेशिक कर्मकराणा कृते एचवनबी इत्याख्याया वीजा इतिअधिकारपत्रस्य अवधि प्रवर्धित येन असंख्याका भारतीया ये संगणकीय क्षेत्रे कार्यरता सन्ति चिन्तामुक्ता अभवन् इति वार्ता